केन्द्रप्रशासनं कषक संघटनानि चान्तरा अद्य पूर्वनिर्धारिता दशमस्तरीया वार्ता श्वः नवदिल्ल्याम् समन्डास्यते कृषि मन्त्रालयेन ह्यः सायं सूचना प्रकाशिता प्रशासनेन राज्येभ्यः केन्द्रशासितप्रदेशेभ्यश्च वस्तुसेवाकर क्षतिपूत्यै षड्सहस्रकोटितोप्यधिकः मासदेयः प्रख्यापितः

अवसरेऽस्मिन् श्रीमोदी अवादीत् यत् देशस्य द्वाभ्यां केन्द्राभ्याम् उत्तरायणात् परं सप्तदशकोटिरूप्यकाणाम् उपहारः प्राप्तः अमुना प्रत्यवादि यतु केवडिया इत्येततु स्थलाय रेलसौबिध्येन अपि च अहमदाबाद सूरत चेति अर्थिक नगराभ्यां मेट्रो रेल परियोजनया योजनेन एतत्क्षेत्रीयो विकासः अतोऽपि तीव्रगत्या विधास्यते इति

अपि च एते द्वे परियोजने सामान्यजनानां भाविकालिकीम् आवश्यकतां समाश्रित्य विनिर्मास्येते इति

इतः प्राक् इमाः वार्ताः अद्य सम्पादयिष्यन्ते इति निर्धारितमासीत् ह्यः सायं काले एकस्मिन् प्रख्यापिते सन्देशे कृषि कृषक मन्त्रालयेन अभिनवो वार्तासमयः संसूचितः अपि च सबलं पुनःस्मारितं यत् प्रशासनं कृषकाणां हिताय तत्सम्बद्ध समस्यानां द्रीकरणाय सन्ततं सर्वथा च वर्तते प्रयासरतम् इति

अस्मिन् त्रयोविंशति राज्येभ्यः षोडशादिक पञ्चशतो तर पञ्चसहस्रकोटिरूप्य तोप्यधिकः राशिः अपरतः दिल्ली जम्मू कश्मीर पुहुच्चेरी चेति त्रिभ्यः केन्द्रशासित प्रदेशभ्यः चत्वारिशत् लक्षाधिक त्यशीत्यधिक चत्ःशतकोटिरूप्यक राशिः प्रकाशितः अवशिष्टेष् अरूणाचल मिजोरम मणिप्र सिक्किम नगालैण्ड चेति पञ्च राज्येष् वस्तुसेवाकरस्य प्रवर्तनेन राजस्वश्रेव्यां न कथमपि प्रभावो दृश्यते क्रिकी आस्ट्रेलियायाः ब्रिस्बेन क्रीडाङ्गणे प्रवर्तमानायाः चतुर्थ निकषस्पर्धायाः पञ्चमे अन्तिमे च दिवसे अद्य भारतं अष्टाविंशत्यधिक त्रिशतं धावनाङ्कानां लक्ष्यं अनुसरति